राष्ट्रिय प्रविधि परामर्शदात समूहेन कोविशील्ड इति सूच्यौषधस्य द्वयोः सूच्यौषधयोः मध्ये अन्तरालावधि द्वादशसप्ताहात् षोडशसप्ताहपर्यन्तं करणार्थं परामर्श प्रदत्त देशे साम्प्रतं यावत् द्विसप्ततिलक्षाधिक सप्तदशकोटिमितानि सूच्यौषधानि जनेभ्यः प्रदतानि स्वस्थतामिति दवि षट् दशमलवोत्तर त्र्यशीतिप्रतिशन्मिता सञ्जाता कोविड संक्रमणेष् अपचितिं निध्याय दिल्ल्यां प्राणवायु आवश्यकतायामपि न्यूनता समागता अपि च मध्यप्रदेशे बिहारे च कोविड संक्रमण प्रकरणेष् नैयून्यस्य संकेतानि सम्प्राप्तानि कोविड्सन्देश प्रिया श्रोतारः समस्तेऽपि देशे प्नः समेधमानेन विकराल कोरोना संक्रमणेन जनसामान्या भयाक़लाः दरीदृश्यन्ते अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीकुर्वन्तु असावधानता नैव आचरन्तु

औषधं अपि समवधानता अपि अथ वार्ता विस्तरेण कोविड अपडेट भारते कोविड प्रतिरोधि सूच्यौषधाभियानं जवीयस्या गत्या प्रवर्तते देशे साम्प्रतं यावत् द्विसप्ततिलक्षाधिक सप्तदशकोटिमितानि सूच्यौषधानि जनेभ्यः वितरितानि सन्ति केन्द्रीयस्वास्थ्यमंत्रालयेन विज्ञापितं यत् विगतास् चत्र्विशतिहोरास् चत्र्णवतिसहस्राधिक अष्टादशलक्षजनाः कोरोना सूच्यौषधानि प्राप्न्वन्तः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 साम्प्रतं यावत् देशे सप्तत्रिंशल्लक्षाधिक द्विकोटिजनाः कोरोनामहामार्या संक्रमिता अभूवन् स्वास्थ्यमंत्रालयान्सारि विगते नक्तन्दिने चत्ःसहस्राधिकजनाः कोरोनासंक्रमणेन मृत्य्म्पगता सन्ति एतत् समेत्य देशे साम्प्रतं यावत् कोविडतः मृत्युमुपगतानां संख्या अष्टपञ्चाशत्सहस्राधिक द्विलक्षमिता सञ्जाता एतदतिरिच्य हयः देशे त्रिलक्षाधिकजनाः कोरोनासंक्रमणम्क्ता अभूवन्

वर्तमाने देशे दशसहस्राधिक सप्तत्रिंशल्लक्षजनाः उपचाराधीना सन्ति भारतीयाय्र्विज्ञानपरिषदन्ग्णं विगते अहोरात्रे देशे चत्ःषष्ठिसहस्राधिक अष्टादशलक्षमितानि कोरोना परीक्षणानि सञ्जातानि प्रधानमंत्री उपवेशन प्रधानमन्त्रिणा नरेन्द्रमोदिना देशे प्राणवायु आपूर्तिम् सममेव औषधापूर्तिमभिलक्ष्य विगते दिवसे समायोजितस्य उच्चस्तरीय समीक्षोपवेशनस्य अध्यक्षता विहिता अस्मिन् उपवेशने कोविड सम्बद्धानां औषधीनां उपकरणानां च विषये विस्तरेण चर्चा समन्ष्ठिता विभिन्नै केन्द्रीयमंत्रिभिः प्रधानमंत्रिणं विज्ञापितं यत् उत्पादन संवर्धनाय सममेव आवश्यक साहाय्योपलब्धतायै निर्मातारः प्रतिदिनं चर्चारता सन्ति आवश्यक औषधीनां उत्पादनस्य भण्डारस्य विषये उपवेशनेऽस्मिन् अधिकारिभि प्रधानमंत्रिणं प्रति विस्तरेण सूचना प्रदत्ता रेमडेसिविर सहितानां समेषां औषधीनां विगतेष् दिवसेष् उत्पादनं संवर्धितम् इत्यपि संसूचितम् प्रधामन्त्रिणा देशे प्राणवायु उपलब्धतां आपूर्तिस्थितिमभिलक्ष्य अपि चर्चा समनुष्ठिता प्रधानमन्त्रिणा नरेन्द्रमोदिना भणितं यत् राज्यानि समयबदधरूपेण प्राणवाय् औषधीन् अभिलक्ष्य सम्यक् रूपेण वितरणं निरीक्षणं च कुर्यू इति

भारत बायोटेक इत्य्पक्रमेण द्विवर्षीयात् अष्टादशवयोवर्गीयेभ्यः बालकेभ्यः कोरोना प्रतिरोधि सूच्यौषधं शीघ्रमेव प्रदास्यते एतत्कृते कोवैक्सीन इति सूच्यौषधस्य दवितीय तृतीय चरणात्मकाय परीक्षणाय अन्मतिः स्वीकृता केन्द्रीय औषध मानक नियंत्रण संघटनस्य विशेषज्ञ समित्या एतेभ्यः परीक्षणेभ्यः अन्मतिः निस्सारिता भारतस्य औषधि महानियंत्रकेन विषय विशेषज समित्याः परामर्शा स्वीकृताः एतानि परीक्षणानि पञ्चविंशत्य्तर पञ्चशतं स्वस्थ स्वयंसेवकेष् करिष्यन्ते परीक्षणावधौ स्वयंसेवकेभ्यः उभे सूच्यौषधे प्रदास्यते उभयो मध्ये अष्टाविंशति दिवसानां अन्तरालो भविष्यति भारत बायोटेकेन भारतीय चिकित्सा अन्संधान परिषद साहाय्येन एतत् निर्मितं वर्तते

मंत्रिमण्डलेन वैदय्तिक भण्डारस्य कृते अष्टादशसहस्राधिक शतैक कोटिमिता राशिः स्वीकृता एतत् मितात्मक परिव्ययेन उत्पादनाधारित प्रोत्साहन योजना अनुमता विगते दिने नवदिल्ल्यां मंत्रिमण्डलियोपवेशनानन्तरं सूचना प्रसारण मन्त्रिणा प्रकाशजावडेकरेण वार्ताहरा संसूचिताः यत् एतस्य उददेश्यं ए सी सी पञ्चाशत् गीगावाटापूर्ति एवमेव निर्माणक्षताग्रहणं वर्तते श्री जावडेकरेण विज्ञापितं यत् अनया योजनया वाहनेभ्यः अतीवलाभो प्राप्स्यते विद्य्त चालित गतिशीलता च संवर्धिता भविष्यति तेन प्रतिपादितं यत् वर्तमानसमये भारतं विंशतिसहस्रकोटिरुप्यात्मकस्य विदयृत संग्रहणयन्त्रोपकरणानां आयातं करोति अनया योजनया देशः आत्मनिर्भरभारतदिशि अग्रेसरो भविष्यति

साम्प्रतं एषा अन्तरालावधि चत्स्सप्ताहात् षड्सप्ताहपर्यन्तं वर्तते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 समूहपरामर्शानुग्रणं गर्भवत्य महिला अपि कोविड सूच्यौषधं ग्रहीतं शक्न्वन्ति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

दिल्ली प्रशासनस्य उपम्ख्यमन्त्रिणा मनीष सिसोदिया वर्येण अद्य प्रतिपादितं यत् कोविड संक्रमण प्रकरणेष् नैयून्यानन्तरं प्राणवाय् आवश्यकता अपि न्यूनता समागता वार्ताहरान् सम्बोधयन् मनीष सिसोदिया प्रोक्तवान् यत् कोविड संवर्द्धित प्रकरणानि अभिलक्ष्य दिल्ल्यां प्राणवाय् आवश्यकता अपि सप्तशतमीट्रिकटनमितात्मिका एव एतदर्थ अवशिष्टा प्राणवाय् अन्येभ्यः राज्येभ्यः प्रदद्यात्